एतदर्थं निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्त्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

मन की बात प्रधानमन्त्री नरेन्द्र मोदी अद्य आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् प्रकटयिष्यति इयं कार्यक्रमस्य षड्सप्ततितमी श्रृंखला भविष्यति कार्यक्रमस्य प्रसारणं आकाशवाण्या द्रदर्शनस्य च सर्वास् प्रवाहिकासु भविष्यति कार्यक्रमस्य हिन्दी भाषाया प्रसारणानन्तरं आकाशवाणीत कार्यक्रम शीप्रमेव सर्वासु क्षेत्रीय भाषासु अपि प्रसारयिष्यते पीएम ग्रामीण भारत प्रधानमन्त्री उक्तवान् यत् भारतस्य सर्वै ग्रामवासिभि कोविड सम्बद्धा सर्वे रक्षोपाया परिपालयन् कोरोना महामार्या द्वितीयां लहरीं परास्ते कुर्यात् गतदिने अखिले हि देशे स्वामित्व योजनाया उद्घाटनं कुर्वन् प्रधानमन्त्री प्रोक्तवान् यत् विगतवर्षे सवैं जनै कोविड उपयुक्तं व्यवहारं कुर्वन् किञ्चिद् काले एव महामार्या बहि आगत्य सुष्ठ स्थिति प्राप्ता आसीत् प्रधानमन्त्री प्रोक्तवान् यत् अस्मिन् वर्षे महामार्गी विरुध्य संघर्षे वयं दृढतरौ स्थितौ स्म यतो हि इदानीं देशे विश्वस्य बृहत्तमं सूच्यौषधाभियानं प्रवर्तते सूच्यौषधीकरण भारते साम्प्रतं यावत् चतुर्दश कोटिमितादपि अधिकजनाः कोविड संक्रमण प्रतिरोधि सूच्यौषधं प्राप्तवन्तः एष् ऊनाशीति सहस्राधिक द्वानवति लक्ष स्वास्थ्यकर्मिणः सूच्यौषधस्य प्रथमां मात्राम् अपि च षष्टि लक्षाधिकाः स्वास्थ्य कर्मिणः सूच्यौषधस्य द्वितीयां मात्रां प्राप्तवन्तः

राज्यसर्वकारेभ्य अस्य सुच्यौषधस्य मृत्यं षड्शत रुप्यकाणि प्रतिमात्रा तत्रैव निजी चिकित्सालयेभ्य क्रयराशि द्वादश शतरुप्यकाणि प्रतिमात्रा भविष्यति निर्यातार्थं सूच्यौषधस्य मूल्यं पञ्चदशत द्वाविंशति डॉलर परिमितम् प्रतिमात्रा अस्ति कडि रम्डिसिंविर केन्द्र प्रशासनेन राज्येभ्यो संक्रमण प्रतिरोधि औषधस्य रेमडेसिविर इत्यस्य आवण्टनेष् वृद्धिः कृता औषधस्य सर्वाधिका पञ्चत्रिंशत सहस्राधिक चतुर्लक्ष मात्रा महाराष्ट्र राज्येन सम्प्राप्ता महावीर जयन्ती अद्य चत्र्विंशतितमस्य अन्तिमस्य च जैनतीर्थंकरस्य भगवत महावीर इत्यस्य जन्मवर्षावसर वर्तते

अन्तच्चि क्रीडा वार्ता आईपीएल क्रिकेट् शृंखलायां गतदिने मुम्बई नगरे क्रीडितायां स्पर्धायां राजस्थान रायल्स इत्येतद् दलेन कोलकाता नाइट राइडर्स इत्येतद् दलं षड्भि क्रीडकै पराजितम् शृंखलायाम् अद्य द्वे स्पर्धा भविष्यत प्रथमा प्रतिस्पर्धा चेन्नई सुपरकिंग्स रायल चैलेंजर्स बेंगलूरू दलयोर्मध्ये अपि च द्वितीया स्पर्धा सनराइजर्स हैदराबाद दिल्ली कैपिटल्स दलयोर्मध्ये भविष्यति